चन्द्रयानं द्वितीयं चन्द्रमस कक्षाया निकटतमायाम् कक्षायाम् प्रवेशम् करोति जम्मू कश्मीरस्य राज्यपाल आश्वासयत् यत् लद्दाखस्य समृद्धाया संस्कृते दायस्य च संरक्षणं भविता

पञ्चराज्येष् नव राज्यपालस्य नियुक्तय जाता वितमन्त्री वित मन्त्रिणा निर्मला सीतारमणेन सार्वजनिक क्षेत्राणां वित्तकोषाणां प्रस्तावितेन विलयेन कर्मचारिणां सेवाहाने चिन्ता खण्डिता सा अवदत् यत् विलयस्य निर्णयेन न कस्यापि कर्मचारिण आजीविका गमिष्यति निर्मला सीतारमण गतश्क्रवासरे घोषणां कृतवती यत् दश प्राशासनिक वितकोषाणां विलयं भूत्वा चत्वार वित्तकोषा भविष्यन्ति

जम्म कश्मीर राज्यपाल जम्म् कश्मीरस्य राज्यपाल सत्यपाल मलिक आश्वासयत यत लददाखस्य समृदधाया संस्कृते दायस्य च संरक्षणं करिष्यते तेन प्रोक्तं यत् लददाख समग्रस्य विकासस्य नवीन सत्रे प्रवेशम् करोति मलिक अवादीत् यत् लेहस्य केन्द्र शासित प्रदेशस्य अनन्तरं लद्दाखे प्राशासनिक सेवास् शैक्षणिक संस्थानेष् च आसनानां संख्यायां परिवर्तनं न भविष्यति राज्यपाल लेहे पोलो प्रांगणे चत्दिर्वसीयस्य लद्दाख समारोहस्य उद्घाटनं कृतवान् स्थापना दिवस रक्षा प्रवक्त्रा प्रोक्तं यत् रविवासरे लेहे फायर एंड फ्यूरी कोर बलेन विंशतितम स्थापना दिवस परिपालित सर्वै कर्मिकै लददाख क्षेत्रीयेभ्य जनेभ्य समर्थन प्रदत्म करगिल युदधस्य अनन्तरं एकोन दविसह्रसखिष्टाब्दस्य सितम्बरमासस्य एकदिनाड़के अस्य स्थापना जाता

उत्तराखण्डस्य भूतपूर्व म्ख्यमन्त्री भगतसिंह कोश्यारी महाराष्ट्रस्य नूतन राज्यपालावेन निय्क्त पूर्व केन्द्रीयमन्त्री आरिफ मोहम्मद खान केरलस्य राज्यपाल भविष्यति

तमिलनाडो पूर्वभाजपा प्रम्खा डॉ तमिलसाई सुंदरराजन तेलंगानाया राज्यपाल भविष्यति ज्ञयशङ्कर विदेशमन्त्री सुब्रह्मण्यम् जयश कर अवदत् यत् भारतं जम्मू कश्मीरं अतिरिच्य कास्मिनपि विषये पाकिस्तानेन सह चर्चायै सन्नदधम अस्ति किंत् पाकिस्तान देश आतंकवादं हिंसा च परित्यजेत्